भवन्तः अपिअस्माभि सहस्रक्षाया उपाय त्रयस्यसङ्कल्पंस्वीक्वन्त् म्खावरणंसन्धारयन्तु सामाजिक दूरतांपालयन्तु पाणिपादंचयथासमयंप्रक्षालयन्तु औषधम् अपि सावधानता अपि इदानींवार्ताःविशदीकृत्य भारत बांग्लादेश प्रधानमन्त्री श्रीनरेन्द्र मोदी उक्तवान् यद् भारत बांग्लादेशौ व्यापार वाणिज्य क्षेत्रयोः समानम् अवसरम् धारयतः अपि च इमौ देशौ आतंकवाद सदृशानि संकटानि अपि संम्खीकुरुतः

तेन आश्वासितं यद् भारतं प्रतिवेशिनः बांग्लादेश्य विकास यात्रायां साहाष्य प्रदानम् अप्रे अपि सततम् अनुवर्तयिष्यति मतदानम् असम प्रदेशे पश्चिम बंगाले च विधानसभा निर्वाचनानां प्रथम चरणस्य कृते मतदानानि अद्य समायोज्यन्ते असम प्रदेशे अद्यतने प्रथम चरणे द्वादशस् जनपदेष् परिव्याप्तानि सप्तचत्वारिंशद् निर्वाचनक्षेत्राणि मतदानं संम्खी कूर्वन्तितत्र इदानीं प्रातः सप्तवादनात् आरभ्य सायं षड् वादनं यावत् मतदानं प्रचलिष्यति पश्चिम बंगाले प्रातः सप्तवादनात् सायं सार्थ षड् वादन पर्यन्तं मतदानं निर्धारितम् अस्ति तत्र प्रथमे चरणे पञ्चसु जनपदेष् परिव्याप्तानि त्रिंशद् विधान सभा निर्वाचन क्षेत्राणि अद्य मतदान रतानि सन्ति अस्मिन् महति राज्ये संकलध्य अष्टस् चरेण् मतदानानि आयोगेन निर्धारितानि सन्ति अस्मिन्प्रदेशे मुख्यतः भाजपा तृणमूल कॉप्रिस दलयोः मध्ये संघर्षः विद्यते निर्वाचनायोगेन सर्वतः कोविड प्रकोपम् आलक्ष्य एकस्मिन् मतदान केन्द्रे अधिकाधिकानां सहस्र जनानां कृते मत प्रदानार्थम् अनुमतिः प्रदत्ता अस्ति निर्वाचनपरिणाम प्रतिबन्ध अत्रान्तरे निर्वाचनायोगेन आगामिनि ऊन त्रिंशे दिनांके प्रातः सप्तवादनात् आरभ्य सायं सार्ध सप्त वादनं यावत् केनापि वार्ता संचार माध्यमेन प्राग्नैर्वाचनिक परिणामस्य प्रकाशने प्रतिबन्धः आरोपितः अस्ति

एष् अशीति लक्षाधिका संख्या स्वास्थ्य कार्मिकाणाम् अस्ति

ततः पूर्वम आदौ आतिथेयेन भारतीय क्रीडक वृन्देन इंग्लैण्डस्य समक्षं त्रयस्विंशद अधिक त्रिशत धावनांकानां विजय लक्ष्यं स्थापितम् आसीत्